देशे गतवासरं यावत् प्रायः सप्त त्रिंशत् सहस्राधिक पञ्चदश लक्षमितेभ्य जनेभ्य कोविड् प्रतिरोधि सूच्यौषधं प्रदतम् देशे कोविड् रोगिणां स्वस्थताया प्रतिशतता प्रवर्ध्य षण्णवति दशमलव द्व्यशीति मिता संवता गोवायां अन्वर्तमानः भारतीयान्ताराष्ट्रिय चलचित्र समारोहः अद्य सम्पन्नतां याति

कोरोणा महामारीं विरुध्य देश ऐक्य भावनया युध्यते

प्रधानमन्त्रीअसम प्रधानमन्त्री नरेन्द्र मोदी प्रावोचद् यत् असमप्रदेश भारतीयन्यासस्य केन्द्र वर्तते अपि च अस्य सर्वाड्गीण तीव्रः च विकास केन्द्रप्रशासनाय महत्वपूर्ण विद्यते इतः प्राक् प्रधानमन्त्री असमस्य जेरेङ्गापाथरे षट्सहस्रोतरैकलक्ष भूमिपट्टानाम् आवण्टन प्रमाणपत्राणां च वितरणं व्यदधात् तेनोक्तं यत् भूम्यधिकार प्राप्त्यनन्तरं क्षेत्रस्य स्थानीय जनेषु सुरक्षा भावना सुदृढा भविष्यति श्री मोदी प्राभाषत यत् प्रशासनस्य सर्वजन सहभागिता नीति कारणात् क्षेत्रे शान्ति प्रगत्योः मार्गः प्रशस्तः जातः प्रशासनम सूच्यौषधम् प्रशासनं ब्रते यत् देशे गतवासरं यावत् प्रायः सप्त त्रिंशत् सहस्राधिक पञ्चदश लक्षमितेभ्य जनेभ्य कोविड् प्रतिरोधि सूच्यौषधं प्रदतम् अतिरिक्त स्वास्थ्य विभागीय सचिवः डॉमनोहर अग्नानी वार्ताहरान् असूचयत् यत् हयः सायं षड् वादनं यावत् देशस्य सप्तविंशतिष् राज्य केन्द्र शासित प्रदेशेष् आहत्य अष्टनवत्यधिक पञ्च शतोतर षट् चत्वारिंशत सहस्राधिकैक लक्षं जनाः अनेन सूच्यौषधेन मसूरिताः कोविडस्थिति देशे कोविड् रोगिणां स्वस्थताया प्रतिशतता प्रवध्य षण्णवति दशमलव द्व्यशीति मिता संवृता विगते अहोरात्रावधौ सप्तदश सहस्राधिका कोविड् रोगिण अस्मात् संक्रमणाद् विम्क्ता

एकस्मिन् ट्वीटालेख्ये असौ न्यगादीत् यत् वैश्विक महामारीं पराजितूं भारतस्य सहयोग प्रशंसनीय तंत्रैव प्रधानमन्त्रिणा नरेन्द्रमोदिनापि प्रोक्तं यत् महामारीं विरुध्य य्द्धे ब्राजीलदेशस्य विश्वसनीययोगदानं विद्यते यद्धि महतो हर्षस्य विषयो वर्तते इति

संयाव समारोह आगामि वित्तीयवर्षस्य केन्द्रीयायव्यय पत्रकनिर्माणस्य अन्तर्गतं संयावविधि हयः उदीच्य खण्डे समाचारित

केन्द्रीयायव्ययपत्रकं संसदि फरवरी मासस्य प्रथमे दिनाइके प्रस्तोष्यते